महाराष्ट्र राजनीतिक घटनाक्रममालक्ष्य संसद सदनयो कार्यजातं स्थगितं श्व द्वि वादनं यावत शिवसेनया राष्ट्रवादी कांग्रेस पार्टी कांग्रेसदलेन च संय्क्तरूपेण राज्ये प्रशासन विरचन संकल्प प्रस्तुत पत्ररूपेण देवेन्द्र फडणवीसेन महाराष्ट्रस्य मुख्यमन्त्री पदभारं स्वीकृतमदय झारखण्ड विधानसभा निर्वाचनानां अदय सायं यावत प्रामांकनं प्रप्रितं शक्यन्ते प्रत्याशिन उच्चतम न्यायालय उच्चतमन्यायालय देवेन्द्र फडणवीसं महाराष्ट्रस्य मुख्यमन्त्री शपथाचरण सम्बदध राज्यपालस्य निर्णयं समाहवान यूतायां याचिकायां श्व आदेशं श्रावयिष्यति केन्द्रेणादय सूचितं यत भभजपादलं राज्ये प्रशासन विरचयित्ं राष्ट्रवादि कांग्रेस पार्टीति दलस्य सर्वेषां चत्स्पञ्चाशत विधायकानां समर्थनं प्राप्तम तेन न्यायालय निवेदित यत ाराज्यपालस्य भगत सिंह कोश्यारी वर्यस्य निर्णयं समाहवान युताया याचिकाया प्रत्युत्तराय दवि त्रि दिवसानां समय अपेक्षित केन्द्रेण न्यायमूर्ते एनवीरमणा न्यायमूर्ते संजीव खन्नाया पीठं सुचितं यत्राराज्यपालेन स्वाधिकारं प्रयूज्य नवम्बर त्रयोविंशे प्रशासन विरचनाय निमन्त्रणं प्रदत्तमासीत शिवसेनया वरिष्ठ अधिवक्त्रा कपिल सिब्बलेन प्रोक्तं यत त्रयाणां दलानां पार्श्वे चतुस्पञ्चाशदुत्तर शतानां विधेयकानां शपथपत्रे भाजपा दलात चतुर्विंश होराभ्यन्तरे बहमत सिदधयर्थ समय भवितव्यम संसद् महाराष्ट्रे राजनीतिक स्थितिमालक्ष्य संसदः सदनयो कार्यजातं श्व यावत स्थगितम लोकसभा राज्यसभयो कार्यजातं श्व दवि वादनं यावत स्थगितम लोकसभायां कार्यजातं यदैव प्रारब्धं तदैव कांग्रेस दलस्य नेतृत्वे विपक्षि दलीय सदस्या एनडीए प्रशासनं विरूद्ध्य सदनमध्ये समागता अध्यक्षेण ओम बिरला वर्येण विपति प्रकटिता

एतदनन्तरं विपक्षि सदस्या स्वीय आसनेभ्य सघोषा उच्चारणं समारब्धम कोलाहलान्तरे भाजपा प्रशासन विरचन जनादेश प्रदत्त शिवसेनया राष्ट्रवादीकांग्रस दल कांग्रेसदलं च प्रशासन विरचन प्रयास रता सन्ति

उपवेशनमिदं संविधान अनुपालनस्य सप्तति वर्ष पृर्त्तये भविष्यति

राष्ट्रपति रामनाथ कोविन्दः संसदः सदनद्वयस्य अधिवेशनं सम्बोधयिष्यति

लोकसभा वित्तमन्द्रिणा निर्मला सीतारणेनादय लोकसभायां प्रवर्तमान वर्षाय कर विधि संशोधन विधेयक प्रस्त्तः

आगामिनो डिसेम्बर मासस्य षष्ठो दिनांकः आवेदन प्रेषणाय अन्तिमा तिथिर्विद्यते इच्छुकाः अभ्यर्थिनः विजप्तेः विस्तृत विवरणं डब्ल्यू डब्ल्यू डब्ल्यू डॉट् न्यूज ऑन एआईआर डॉट् कॉम इति अन्तर्जाल स्थानके द्रष्ट्मर्हन्ति